प्रधानमन्त्रीमन की बात प्रधानमन्त्री श्रीनरेन्द्रमोदी अय पुनरेकवारं मन की बात इत्याकाशवाणी कार्यक्रमे देशवासिनो जनान् प्रति स्वीयं मनोगतं प्रकाशयिष्यति

हरियाणा मुख्यमन्त्रि शपथः वरिष्ठो भाजपा नेता मनोहर लाल खट्टरः हरियाणा राजभवने अद्यापराह्रे समायोज्ये कार्यक्रमे हरियाणायाः मुख्यमन्त्रि पदाय शपथं ग्रहीष्यति अनेन सहैव सः राज्यस्यास्य मुख्यमन्त्रित्वेन स्वीयं द्वितीयं कार्यकालं समारप्स्यते ततः पूर्व गतदिवसे हरियाणा राज्यपालः सत्यदेव नारायण आर्य राज्ये नूतन प्रशासन संरचनायै भाजपा वृन्दम् आमन्त्रितवान् खट्टरस्य नूतने प्रशासने भाजपा सहायिनो जेजेपी दलस्य प्रमुखो द्ष्यन्त चौटाला उप मुख्यमन्त्रि पदं संभालयिष्यति अट्रेदं स्मर्तव्यमस्ति यद राज्येऽस्मिन् सद्यः समायोजितेष् नवति सदस्यात्मक विधानसभा निर्वाचनेष् चत्वारिंशद आसनानि भाजपा दलेन दश जेजेपी दलेन सप्त निर्दलीयैश्व विजितानि

टोक्यो नगरे लौहसार क्षमताधिकृत्य मन्त्रिस्तरीयं वैश्विक सम्मेलनं सम्बोधयता श्रीप्रधानेन प्रोक्तम् यद भारते लौहसारस्य विपणि याच्ञायां वृद्विरेव उत्पादन क्षमता वर्धनाय उत्प्रेरिका भविष्यति दीपावली ज्योतिषां पर्व दीपावली अद्य अशेष देशे सोल्लासं समायोज्यते